उक्तं च यत् विपक्षिदलानि कृषकान् मिथ्याप्रचारेण असम्यकरीत्या च भ्रातिं जनयन्ति राष्ट्रपतिना प्रधानमन्त्रिणा च भूतपूर्वप्रधानमन्त्रिण अटलबिहारीवाजपेयीवर्यस्य आविर्भावदिवसावसरे तस्मै श्रद्धाक्समानि अर्पितानि अशेषेण राष्ट्रेण सहा कोविडसंक्रमणस्य स्वास्थ्यपरिष्कारपरिमिति दशमलवोत्तर सप्त सप्त अधिक पञ्चनवति इति लक्षिता ख्रीष्टीय पर्व क्रिसमस् अशेषे जगति परिपाल्यते महत् उत्साहेन राष्ट्रपतिना प्रधानमन्त्रिणा अन्यै गणमान्यै च श्भकामाना प्रदत्ता ख्रीष्टमतावलम्बिन कृते सम्पूर्णे भारते क्रिकेटक्रीडायां श्वो भारत आस्ट्रेलिया दलयो संघट्ट

वार्ताः विस्तरेण जावडेकर अटलवर्य सूचनाप्रसारणमन्त्री प्रकाश जावडेकर भूतपूर्वप्रधानमन्त्रिणे अटलबिहारी वाजपेयीवर्ष्याय तस्य जयन्तुपलक्ष्ये श्रद्धाव्जलिं अर्पितवान तेनोक्तं यत् वाजपेयीवर्यस्य सिद्धान्ताधारितराजनीति तस्य जीवनं च आयत्यां यूनांकृते प्रेरणादायकं भविष्यति श्रीजावडेकरेण एकेन दृश्यश्रव्यसंदेशमाध्ययेन अवसरे तस्य स्मरणं कृतं यदा पुणे नगर्व्याम् आयोजिते राजनीतिककार्यक्रमे श्रीअटलबिहारी वाजपेयीवर्येण सह तस्य विशिष्टमेलनं कृतमासीत् तेनोक्तं यत् अटलबिहारीवाजपेयीवर्येण स्वकीयेन अप्रतिमव्यक्तित्वेन सर्वेषां हृदयं विजितम् आसीत् श्रीजावडेकरेण जनेभ्य सुशासनदिवसावसरे श्भकामना अपि वितरिता वाजपेयी श्रद्धांजलि राष्ट्रपतिना श्रीरामनाथकोविंदेन प्रधानमंत्रिणा श्रीनरेन्द्रमोदिना भृतपर्वप्रधानमन्त्रिणे अटलबिहारीवाजपेयीवर्याय जयन्तीम् उपलक्ष्य नवदिल्ल्यां सदैव अटल स्मारके इत्यत्र तस्मै श्रद्धास्मनानि अर्पिताति केन्द्रीयमन्त्रिणा अमितशाहेन राजनाथसिंहेन निर्मलासीतारामनेन पीयूषगोयलेन हरदीपसिंहपुरिणा डॉहर्षवर्धनेन लोकसभाध्यक्षेण ओमबिरला इत्ययुना समेता अनेकै गणमान्यै च भूतपूर्वप्रधानमन्त्रिणे अटलबिहारीवाजपेयीवर्याय श्रद्धाञ्जलय अर्पिता प्रधानमन्त्री अटलश्रद्धाञ्जलि प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिना अद्य संसद केन्द्रीयकक्षे भूतपूर्वप्रधानमन्त्रिणे भारतरत्नप्रतिष्ठिताय अटलबिहारीवाजपेयीपवर्याय तस्मै श्रद्धास्मनानि अर्पितानि तेन महते स्वतन्त्रतासंग्रामसेनानिने शिक्षाविदे भारतरत्नबहमालंकृताय पण्डितमदनमोहनमालवीयाय तस्य जयन्त्यूपलक्ष्ये अपि श्रद्धाब्जलय समर्पिता श्रीवाजपेयीवर्यस्य षण्णवतितमे जयन्ती अवसरे श्रीनरेन्द्रमोदिना अटल बिहारी वाजपेयी इन पार्लियमेंट अ को मैमोरेटिव वॉल्यूम इति पुस्तकस्य अपि विमोचनं कृतमु यस्मिन् भूतपूर्वप्रधानमन्त्रिण सकलजीवनस्य सम्पर्णकार्याणां वर्णनं कृतं वर्तते पुस्तकस्य अस्य संकलन प्रकाशन लोकसभासचिवालयेन कृतं वर्तते अस्मिन् पुस्तके वाजपेयीवर्यस्य संसदि प्रदत्तानि महत्वपूर्णानि भाषणानि संकलितानि सन्ति अस्मिन् पुस्तके भूतपूर्वप्रधानमन्त्रिण सार्वजनिकं जीवनमवलम्व्य कानिचन दूर्लभानि चित्राणि अपि वर्तन्ते

गृहमन्त्रिणा अमितशाहेन दिल्लीयां महरौलीनगरे जनसभा सम्बोधयता उक्तं यत् प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिना सार्द्धद्विवर्षे दशकोटिकृषकाणां वित्तीयकोषेष् पञ्चनवतिसहस्रकोटिरुप्यकाणि साक्षात् आवंटितानि सन्ति तेनोक्तं यत् त्रयोदशोत्तरद्विसहस्रतमवर्षत चतुर्दशोत्तरद्विसहस्रतमेवर्ष यावत् यदा यूपीए इत्यस्य प्रशासनमासीत् तदा आयव्ययपत्रके कृषकाणां कृते एकविंशतिसहस्नवशतं कोटिरुप्यकाणि आवंटितानि आसन् श्रीमोदिना तत् सम्वर्ध्य एकलक्षचतृश्त्रिंशत्सहस्र त्रयशतनवनवतिकोटिरुप्यात्मक कृत वर्तते श्रीअमितशाहेन उदीरितं यत् वास्तविकरूपेण श्रीनरेन्द्रमोदी कृषकाणां शुभचिन्तको वर्तते रक्षामन्त्रिणा राजनाथसिंहेन अद्य दिल्ल्यां सभा संबोधिता तेन आश्वासितं यत् मोदीप्रशासनं एतादृशं किमपि नैव आचरिष्यति यत् कृषकाणां हिते न स्यात् तेनोक्तं यत् वार्ताभिमुखीकरणेन सर्वासां समस्यानां समाधानं संभवं वर्तते तेन अग्रे उक्तं यत् श्रीनरेन्द्रमोदी कृषकै सह संवादसंस्थापनं वाव्छति अत तेन कृषका वार्तालापाय आमन्त्रिता सन्ति राजधान्यां दिल्ल्यां स्वास्थ्यमन्त्री डॉ हर्षवर्धनेन अपि कमलानगरे वित्तमन्त्रिणा निर्मलासीतारामनेन रंजीतनगरे कृषका सम्बोधिता आवासनागरमन्त्रिणा हरदीपसिंहपुरिना अपि जनकपुर्वा कृषकसम्मेलनं सम्बोधितम् भवन्त भवत्यश्च संस्कृतवार्ताया संस्करणमिदं इदानीम् आकाशवाणीत श्रृण्वन्ति प्रधानमन्त्री कृषक प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिना अद्य प्रधानमन्त्रिकृषकसम्माननिधि इति योजनान्तर्गत वित्तीयलाभस्य अपर भाग दृश्यश्रव्यान्तर्जालमाध्यमेन लाभार्थिभ्य कृषकपरिवारेभ्य आवंटित तेन अष्टदशकोटितोऽधिकराशि प्राय नवकोटिकृषकेभ्य तेषु वित्तीयकोषेष् सम्प्रेषित अवसरेऽस्मिन् प्रधानमन्त्रिणा षट्राज्यै लाभार्थिभ्य कृषकेभ्य सहवार्ता आचारिता कृषकै पीएम किसान इति योजना विषये अन्येष् विभिन्नप्रशासकीयकल्याणकार्यक्रमविषयेष् च स्वकीया अुनभवा अपि प्रधानमन्त्रिणा सह प्रस्त्ता कृषकै उक्तं यत् ते सर्वे प्रधानमन्त्रिकृषकसम्माननिधि इति योजनात लाभान्विता सन्ति अनया योजनया कारेण एव तेषाम् उत्पादनं विवर्धयित् साहाय्यं जातम् एक कृषकस्य वच आसीत् यत् प्रधानमन्त्री कृषकयोजनया शस्यविविधता आनयनकार्यक्रमेण च असौ स्वकीयं उत्पादनं कृषि उपज विपणन समिते महापणात् बहि विक्रेतुम् अहों अस्ति किञ्च स्वकीयस्य परिवारस्य कृते अधिक लाभ प्रदातुं शक्यते प्रधानमन्त्रिणा उक्तं यत् असौ दुःखमनसो वर्तते यत् पश्चिमबंगालस्य सप्तातिलक्षाधिका कृषका प्रधानमन्त्रीकृषकयोजनात लाभान्विता न सन्ति तेनोक्तं यत् पश्चिमबंगालस्य त्रयोविंशतिलक्षकृषकै अस्या योजनाया लाभप्रापणार्थं आनलाइन इति अन्तर्जालीयम् आवेदनं कृतं आसीत् परञ्च तत्रत्येन राज्यप्रशासनेन सत्यापनप्रक्रिया निषिद्धा कृता तेन अग्रे उक्तं यत् कृषकाणां शस्य कृते उत्कृष्टागोपसुविधा उपलब्धयितुं प्रधानमन्त्रिशस्यागोपयोजना आरब्धा वर्तते यया कोटिमिता कृषका लाभं स्वीकुर्वन्ता कोविड कोविड महामारीत निरसनाय भारतेन रचितं कीर्तिमानम् महामारी प्रकरणेष् अनारतं अपचित्या सह संक्रमितरोगिसंख्यायां न्यूनता परिगण्यते यतोहि दशमलवोत्तर सप्त अष्ट अधिक द्विमितं वर्तते अधिदेशं कोरोना संक्रमणास्य सक्रियरोगिणां संख्यायां विगते अहोरात्रे प्राय द्विसहस्रजनानां अपचिति दृश्यते संक्रमित रोगिणां आहत्य संख्या एकाशीत्युत्तर द्वि लक्षमिता वर्तते कोविडसंक्रमणत स्वस्थीभवनस्य परिमित्यामपि परिष्कार दरीदृश्यते एतत् विवर्ध्य दशमलवोत्तर सप्त सप्त अधिक पञ्च नवति मितो वर्तते अध्ना यावत् आहत्य सप्त नवति लक्ष सप्तदशसहस्र संक्रमिता रोगिण स्वास्थ्या जातासन्ति

बीसीसीआई इत्यनेन भारतीयदलस्य एकादशक्रीडकानां उल्लेख कृतो वर्तने